योजनया अष्टपंचाशत् दशमलव पंच लक्षमिता कर्मिण लाभान्विता भवितार मन्त्रिमण्डलेन सार्वजनिकवाई फाई इति अन्तर्जाल सौविध्यस्य प्रतिष्ठापनार्थम अपि अन्मोदितम् अस्ति कृषिमन्त्री कृषकान् समाश्वासयत् यत् न्यूनतम् समर्थन मूल्यं यथावदेव प्रवर्तयिष्यते प्रधानमंत्री नरेंद्र मोदी श्वः संसद मार्गे नूतन संसद भवनस्य आधारशिलां स्थापयिष्यति महामार्या स्वस्थतामानम् देशे चत्र्णवति दशमलव षट्षट्परिमितम् अस्ति

प्रवर्तमानवित्तीयवर्षाय अन्मोदितायाम् अस्यां योजनायां चत्रशीत्युत्तर पंचदश कोटि मुद्राया व्ययो भविता ध्यातव्यमस्ति यत् योजनाया प्रवर्तनकाल त्रि वर्षात्मक स्निश्चितो विद्यते

श्रमवृत्यवसरमन्त्री सन्तोष गंगवारः अब्रवीत् यत् योजनया अष्टपंचाशत् दशमलव पंच लक्षमिता कर्मिण लाभान्विता भवितार एतदतिरिच्य मन्त्रिमण्डलेन सार्वजनिकवाई फाई इति अन्तर्जाल सौविध्यस्य प्रतिष्ठापनार्थम् अपि अनुमोदितम् अस्ति येन जना शुल्कं विनैव वाईफाई जालप्रयोगं कर्त् शक्न्य्ः संचारप्रिविधिमन्त्री रविशंकरप्रसाद प्रत्यपादयत् यत् सार्वजनिक वाई फाई अन्तर्जाल प्रयोग प्रणाल्या नाम पीएम् वाणी इति भविष्यति

श्रीतोमर प्नः अकथयत् यत् उद्यमिन उत तेषां मध्यस्था सम्पूर्ण राशिदानात् प्राक् विनिमयस्य समाप्तौ अक्षमा भविष्यन्ति मन्त्री अकथयत् यत् कृषि विधेयकानुसारं कृषका स्वोत्पादनानां मूल्यनिर्धारणे समर्था भविष्यन्ति स उक्तवान् क्रेतार समयेन कृषकेभ्य उचितं मूल्यं ददय् अथवा विवादस्थितौ कृषका न्यायाधिकारणेष् गन्तुं शक्नुवन्ति इति तोमर चलायमाने कृषकान्दोलनसन्दर्भे अगादीत् प्रधानमंत्री प्रधानमंत्री नरेंद्र मोदी श्वः संसद मार्गे नूतन संसद भवनस्य आधारशिलां स्थापयिष्यति आत्मनिर्भरभारताभियानस्य अन्तर्गतं नूतनं भवनम् इदं निर्मास्यते स्वतन्त्रताप्राप्तेः अनन्तरं प्रथमं तावत् भारतीय इतिहासे जनानां संसद्भवनं निर्मास्यते ध्येयमस्ति यत् राष्ट्रं दवाविंशत्य्तर द्विसहस्रतमे वर्ष स्वीयं पंचसप्ततितमं स्वतन्त्रतादिवसम् यावत् अभिनव भारतस्य आवश्यकता अपेक्षान्ग्णं भवनमिदं भविता

अद्यावधि आहत्य कुलसंक्रमणग्रस्ता पंचाशद्रतर अष्टशताधिक पंचत्रिंशत्सहस्रोतर सप्तनवति लक्षसंख्याका जना संजाता स्वास्थ्य मंत्रालयानुसारं विगते अहोरात्रे विषाणुद्वष्प्रभाविता दवयधिकचत्ःशतं जना कालकवलिता अभूवन् एवं महामारीत दिवं प्रसातानां संख्या समेध्य अष्टाधिक त्रिशतोतर एक चत्वारिंशत्सहस्रमिता समंकिता देशे संक्रमणग्रस्तानां क्लसंख्या इदानीं नवाधिक नवशतोतर अष्टसप्तति सहस्राधिक त्रिलक्षमिता विदयते गते रात्रिंदिवे पंचत्रिंशदधिक षट्शतोतर षट्रत्रिंशत्सहस्रं विषाण्पीडिता आरोग्यम् अवाप्तवन्तः अपरत्र अद्यावधि स्वस्थीभूतानां संख्या संवध्य एकाशीत्य्तर पंचशताधिक पंचदशसहस्रोतर त्रिणवतिमिता संवृता स्वस्थतामानम् देशे चत्र्णवति दशमलव षट्षट्परिमितम् अस्ति भारतीय चिकित्सा अन्संधान परिषद् इति आईसीएमआर ब्रते यत् गतदिने भूयोपि सप्तशताधिक दवाविंशतिसहस्रोतर दशलक्षजनानां कोरोनाप्रारूपपरीक्षणं विहितम्

इमे प्रदेशा आंध प्रदेश गोवा ग्जरात हरियाणा कर्नाटक केरल तेलंगाना त्रिप्रा उत्तर प्रदेश वर्तन्ते एतेष् राज्येष् सार्वजनिक वितरणप्रणाल्यां आवश्यकशंसोधनस्य प्रक्रिया अपि पूरिता एतदालक्ष्य वित्तमन्त्रिणा प्रोक्तं यत् इदमेकं महत्त्वपूर्ण संशोधनं अस्ति विशेषेण तेभ्य कर्मकरेभ्य ये अन्यस्मिन् राज्ये कार्य क्वन्ति अत्रावसरे निर्मला सीतारमण वर्या इदमपि सूचितं यत् अस्या योजनाया क्रियान्वयनं कर्त् अन्यानि अपि राज्यानि अग्रसराणि वर्तते

आरक्षिसूत्रान्ग्णं आतंकवादिनां ग्प्तसूचनाप्राप्ते अनन्तरं तत्र अन्वेषणाभियानं प्रवर्तितम् आसीत् आतंकवादिभि गोपनप्रस्सरं स्रक्षादलेष् गोलिकावर्षणं आरब्धम् मृतातंकवादिनां अभिधानं अन्वेषणपरं वर्तते अस्मिन् गोलिकावर्षणे एक स्थानीयो व्रणित

एतस्योददेश्यं भ्रष्टाचारनिवारणं अपि च भ्रष्टाचारविरूद्धं जनजागरणं वर्तते दिवसम्पलक्ष्य संयुक्तराष्ट्रस्य महासचिवेन एंतोनियो गुतेरेस वर्थेण प्रोक्तं यत् भ्रष्टाचार अनैतिक अपि च जनै सह विश्वासघातोऽस्ति इदमपि उक्तं यत् संकारापन्ने समये भ्रष्टाचारः इतोऽपि हानिदायकः अतः एव अस्मिन् वर्षे अन्ताराष्ट्रिय श्रष्टाचार दिवसस्य मुख्यो विषय सत्यनिष्ठया महामार्योन्मूलनम् इति स्वीकृतम्

असौ निकटभूतकालिक राजस्थान तेलंगाना अरूणाचलप्रदेशेष् सम्पन्नेष् निर्वाचनेष् दृष्टिगोचर भवति यत्र हि देशस्य अपि मानसिकता परिलक्षिता भवति अदय नवदेहल्यां वार्ताहरै सह श्री जावड़ेकर न्यगादीत यत राजस्थानप्रदेश भाजपादलस्य निर्णायकरूपेण कांग्रेसदलस्य पराभव सहैव तेलंगानाप्रदेश न केवलं दबका विजय अपित् बहद हैदराबाद नगरपालिकायामपि एकोनपंचाशत क्षेत्रेष् जय तथा च अरूणाचल प्रदेशस्य परिणामै जनानां विश्वास भाजपादले प्रदर्शित दरीदृश्यते